बिहारे जलौघस्थितिः साम्प्रतमपि गभीरायते

गान्धी जयन्ती कृतज्ञराष्ट्रृं राष्ट्रपितुर्महात्मगान्धिनः सार्धशततमीं जयन्तीम् उपलक्ष्य तस्मै श्रद्धाव्जलि समर्पयति अवसरेऽस्मिन् अशेष देशे विदेशेष् च नैके कार्यक्रमाः समायोज्यमानाः सन्ति प्रधानमन्त्री श्रीनरेन्द्र मोदी नवदिल्ल्यां राजघट्ट स्थे समाधि स्थले संसद भवने च राष्ट्रपित्रे श्रद्धा स्मनांसि समर्पयिष्यति राजघट्टे अद्य प्रातरभ्य सर्वधर्मप्रार्थनासभापि समायोज्यमाना विद्यते यत्र उपराष्ट्रपतिः श्रीएम् वेंकैयानायड्ः नातिचिरमेव समुपस्थास्यते अद्य सायं श्रीमोदी अहमदाबादस्थं महात्म गान्धिनः साबरमत्याश्रमं सम्प्राप्य तत्र सकृत्यप्रयोज्य प्लास्टिक् पदार्थानाम् उब्छनाभियाने भागं ग्रहीष्यति पश्चात् सः साबरमत्याः परिसरे विंशति सहस्राधिकानां ग्राम प्रमुखाणाम् उपस्थितौ देश मुक्त शौच मुक्त घोषयिष्यति गतसायं गान्धि जयन्त्याः पूर्वसन्ध्यायां प्रस्तुत सन्देशे राष्ट्रपतिः श्रीरामनाथ कोविन्दः अवदत् अवदत् अयत् अमहात्मा गान्धी विश्वजनीनः आदर्श पुरुषः विद्यते अपि च तेन साम्प्रदायिकसौहार्दास्पृश्यतानिवारण महिलोत्थानसदृशाः नैके नृतनाः पन्थानः राष्ट्रस्य विकासाय प्रशस्तीकृताः शास्त्री जन्मतिथि गान्धि जयन्त्या सममेव कृतज्ञराष्ट्रम् अद्य पूर्व प्रधानमन्त्रिणं स्वर्गीय लालबहादर शास्रिणम् अपि तदीय जन्मतिथौ सादर संस्मरति उपराष्ट्रपतिः श्रीएमवेंकैयानायड़ः प्रधानमन्त्री श्रीनरेन्द्र मोदी अद्य अवसरेऽस्मिन् राष्ट्रिय राजधानां दिल्ल्यां विजय घट्टस्थे तदीय समाधि स्थले श्रद्धा कुसुमानि समर्पयिष्यति

एकेन शासकीय प्रवक्त्रा पाकिस्तानीय प्रधानमन्त्रिणः संबोधनम् अलीकाख्यानत्वेन वर्णितम् प्रवक्त्रा प्रोक्तं यत् मिथ्या भाषणैः पाकिस्तानं जम्मूकश्मीरे स्वीयम् आततायि कृत्यं गोपयित् प्रयतते

जलाप्लावजन्मास् घटनास् इदानीं यावत् राज्ये षट्पञ्चाशज्जनाः मृत्युम्खं प्रविष्टाः

सूरते समायोजितायां प्रतिस्पर्धायामस्यां भारतेन भ्रमणकोरिदलम् एकपञ्चाशद धावनाड्कैः पराजितम्